केन्द्रीयो स्वास्थ्यमन्त्री हर्षवर्धनश्चापि अस्मिन्न्पवेशने भा ं ग्रहीष्यति इति अपरत शतं राष्ट्राणां राजद्रता प्णे न रे सीरम इंस्टीट्यूट ऑफ इंडिया इति जेनेवा बायोफार्मा चेति संस्थानं प्रयान्ति